पीएम कोरोना प्रधानमन्त्री नरेन्द्रमोदी समुदीरयत् यत् असौ कोरोनासंक्रमणं परास्तुं कटिबद्वेभ्यः सर्वेभ्यः कार्तज्ञं प्रकटयति स्वीय ट्वीटालेखे श्रीमोदी प्राबोचत् यत् संक्रमणस्थितिं इमां परास्तुं वयं सामाजिक दूरी स्थापयामः तेन प्रोक्तं अध नव वादने जनता समूह संरोधः समाप्तः भवितुं शक्यते किन्तु अस्य कथमपि अयमाशयः नैवास्ति यत् वयं उत्सवं पालयेम श्रीमोदी स्पष्टीकृतं अयं हि संकमण निवारणाय युद्धस्य वर्तते प्रारम्भः अस्माभि सुदीर्घः युद्धःसम्मुखीकरणीयो वर्तते प्रधानमन्त्रिणा श्रीमोदिना देशवासिनः कोरोना संक्रमणं परास्तुं प्रशासकीयानां आवश्यकनिर्णयानां अन्पालनाय अपि विनिवेदिताः

उत्तरप्रदेशप्रशासनेन राज्यस्य षोडशजनपदेस् सर्वविधसेवाः सन्ति स्थगिताः मुख्यमन्त्रिणा योगिना जनाः गृहे स्यात्रं अध्यर्थिताः

प्रशासनेन नागरीय क्षेत्रेषु चतुश्वत्वारिंशदधिकैकशत निषेधाज्ञा प्रवर्तिता झारखण्ड प्रशासनेनापि अस्य मासातं यावत् राज्ये सर्वविधसेवाः निरस्तीकृताः अरुणाचल प्रशासनेनापि अस्य मासातं राज्यं सुरक्षादृशा सर्वतादृशा पिहितम् अवधेयास्पदं वर्तते यत् अस्मिन् क्रमे सर्वविध आवश्यक सेवाः यथावस्थमेव प्रवर्तयिष्यन्ति दिल्ली बॉकडाठन दिल्ली प्रशासनेन राष्ट्रिय राजधानी क्षेत्रे कोविड नवदश संक्रमणम् अवरोधं सर्वविधसेवाः निरस्तीकृताः राष्ट्रिय राजधानीक्षेत्रे प्रातः षड् वादनात् मध्यरात्रि यावत् सर्वाः सेवाः सबाधिताः सन्ति दिल्ल्याः उपराज्यपालेन साकं स एकस्मिन् संयुक्तवार्ताहरसम्मेलने मुख्यमन्त्री स्पष्ट्यकरोत् यत् चिकित्सकीयसेवाः समेत्य आवश्यकसेवायै अनुमतिः प्रदीयते अस्मिन् क्रमे सर्वविध परिवहन सेवा अपि वाधिताः सन्ति अत्यावश्यक सेवारतेभ्यः सौविध्यं प्रदातुं दिल्ली परिवहननिगमसम्बद्वानि प्रतिशतं पञ्चविंशतिमितानि बसयानानि सेवारतानि सन्ति तेन प्रोक्तं आवश्यक सेवाभ्यो गच्छदभ्यो न किमपि प्रमाणम वर्तते अपेक्षितम